कोविड आपनिंग कोरोणामहामार्या विरुद्धं देश ऐक्यभावनया युद्धयति

लोकानां संरक्षणाय तान् सुरक्षितस्थानानि नेतुं कार्याणि तीव्रगत्या प्रचलिन्त वातावरण विभागानुसारि चक्रवातस्य गतासु होरासु गति एकादश किलोमीटरमिता प्रतिहोरं वर्तते अयं चक्रवातो भीषणं रूपं धारयति चक्रवातकारणेन अधिकांशत जिलास् अतिवृष्टि सञ्जायते उत्तर चेन्नय्यां गत चतुर्विंशतिहोरासु षोडशसेण्टीमीटर परिमिता वर्षा जाता धीवरा अपि प्रशासनेन सञ्चेतिता यत् ते समुद्रं प्रति मा गच्छेय्

श्रीमोदी उक्तवक्तव्यं लखनौ विश्वविद्यालयस्य शताब्दीसमारोहं सम्बोधयन् प्राकाशयत् समारोहे उपस्थितान् विदयार्थि शिक्षकान् च सम्बोधयता प्रधानमन्त्रिणा उक्तं यत् विश्वविदयालया न केवलम् उच्चशिक्षाया केन्द्राणि अपित् चरित्रनिर्माणय प्रेरणाकेन्द्राणि अपि सन्ति श्रीमोदिनोक्तं यत् शतं वर्षाणां कालखण्ड न केवलं कालखण्ड अपित् अपारोपलब्धीनां जीवन्तेतिहास विद्यते

द्विदिवसात्मकस्य अस्य अधिवेशनस्य श्भारम्भ हय गुजरातस्य केवडियायाम् अभूत् अस्य समारोपावसरे अद्य प्रधानमन्त्री नरेन्द्रमोदी दृश्यश्रव्यप्रणाल्या अधिवेशनं सम्बोधयिष्यति

दिसम्बर मासस्य एकतारिकाया अनन्तरम् इमे नियमा प्रभाविन भवितार एतेषां नवीनदिशानिर्देशानाम् उद्देश्यं देशे प्रसृतस्य कोविडनवदश संक्रमणस्य नियन्त्रणम् अस्ति दिशानिर्देशान्सारं स्थानीयजिलाधिकारिण आरक्षिण नगरनिगमाणां च अधिकारिण इदं सुनिश्चितं करिष्यन्ति यत् सुरक्षानियमानां सम्यक्तया परिपालनं भवेत्

अध्ना आगामि पञ्चवर्षेष् आधारभूत क्षेत्रेष् राष्ट्रिय निवेश अवसरंचना कोष धनं उपकल्पयिष्यति

राष्ट्रियविधिदिवसत्वेन अपि आमान्यते अयं दिवस ध्येयमस्ति यत् गतशताब्दस्य ऊनपञ्चाशततमे वर्षे नवम्बर मासस्य षडविंशे दिवसे स्वतन्त्र भारतस्य संविधानसभया औपचारिक रूपेण संविधानम् स्वीकृतम् आसीत्